केन्द्रप्रशासनस्य चक्रीयं कृषकसंघटनस्य च मध्ये नवम सम्भाषणं गतदिवसे नवदिल्ल्यां सम्पन्नम् अप्रिमचक्रीयं सम्भाषणं मासस्यास्य उनविंशे दिनांके पुनरायोजयिष्यते

भवन्तोऽपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरक सन्धारयन्तु सामाजिक दुरतां परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु यावन्नौषधम् तावन्न शैथिल्यम् इदानीं वार्ता विस्तरणि प्रधानमन्त्री कोविडमसूरणाम् प्रधानमन्त्री श्रीनरेन्द्र मोदी विश्वस्य बृहत्तमं कोविड मस्रणाऽभियानम् अद्य प्रातः दृश्य श्रव्य प्रणाल्या प्रारभते अस्य राष्ट्र व्यापिनो मसूरणाऽभियानस्य अखिल प्रदेश स्थानि षट् त्रिंशत् शत केन्द्राणि दूश्य श्रव्य प्रणालिकया परस्परं संयोक्ष्यन्ते प्रारम्भे सकलेष् केन्द्रेष् प्रतिदिनं शत लाभार्थिनां मसूरणं प्राथम्याधारेण विधास्यते कोविड मसूरणस्य प्रथमे चरणे देशस्य स्वास्थ्य कार्मिकाः शासकीय निजीय कार्मिकाः समेकित बाल विकास सेवा सम्बन्धित कार्मिकाश्च मसूरणौषधमाप्स्यन्ति कोविड् स्वस्थजनप्रतिशतता देशे कोविड महामारीतः अद्यावधि स्वस्थताम्पगतानां जनानां प्रतिशतता प्रवर्ध्य सम्प्रति षण्णवति दशमलव पञ्च त्रि परिमिता संवृत्ताऽस्ति भारतं कोविड़ महामार्याः प्रशमनाभियानस्य दिशि तीव्रगत्या पदं धत्ते विगतास् चतुर्विंशति होरास् देशे कोविड संक्रमणस्य नूतन प्रकरणानि सार्ध पञ्च सहस्र प्रायाणि समक्षमायातानि केवलम् एकनवत्यधिकाः शतं जनाश्च मृत्युमुपगताः शासन कषक सम्भाषणम् केन्द्रप्रशासनस्य कृषकसंघटनस्य च मध्ये नवम चक्रीयं सम्भाषणं गतदिवसे नवदिल्ल्यां सम्पन्नम् कृषि मन्त्री नरेन्द्र सिंह तोमर कृषक प्रतिनिधिभिः सार्थं समायोजितात् सम्भाषणोप वेशनाद् अनन्तरं वार्ताहरान् व्यज्ञापयत् यदेतस्मिन् संवाद चक्रेऽपि कथ्चिदभीष्टः परिणामो नैव प्राप्तः तेनोदीरितं यद् अप्रिम चक्रीयं सम्भाषणं मासस्यास्य उनविंशे दिनांके प्नरायोजयिष्यते

भारत नेपाल संयुक्तायोगस्य गतदिने नवदिल्ल्यां संपन्ने षष्ठे मन्त्रणोपवेशने विदेशमन्त्री डॉ एस् जयशंकरः नेपालस्थः तत्समकक्षः प्रदीप कुमार श्यावली च संयुक्तरूपेण आध्यक्ष्य निर्व्यढवन्तौ